प्रधानमन्त्री योगपरस्कारः प्रधानमन्त्री नरेन्द्र मोदी देशे विदेशेष् च योगस्य प्रचाराय प्रसाराय च विशिष्ट भूमिकायै अवचितेभ्यो जनेभ्यः अदय नवदिल्ल्यां योग प्रस्कारान् वितरिष्यति एषां वार्षिक योग प्रस्काराणां वितरण परम्परायाः प्रारम्भः श्रीमता मोदिनैव विगते षोडशाधिक दवि सहस्रतम वर्षे चण्डीगढे अन्तराष्ट्रिय योग दिवसम् उपलक्ष्य समायोजिते कार्यक्रमे विहित आसीत् अद्यतने प्रस्कारार्पण समारोहे प्रधानमन्त्रिणा आय्ष प्रणाल्या चिकित्सा रतानां नैकेषां ख्यात वैद्यानां नामभिः द्वादश प्रैष म्द्राः अपि लोकाय समर्पयिष्यन्ते एतदतिरिच्य श्रीमोदिना देशस्य विभिन्नेष् भूभागेष् दश न्तनानि आय़ष स्वास्थ्य कल्याण केन्द्राणि अपि उद्घाटयिष्यन्ते वनरोपणाभियानम जावडेकरः देशे वनरोपण कार्यक्रमं प्रोत्साहयित् केन्द्रप्रशासनं विभन्नेभ्यो राज्येभ्यः सप्तसहस्रकोटि रूप्यकाणां सहाय्य राशिम् उपायनी करिष्यति सन्दर्भेऽस्मिन् गतदिवसे नवदिल्ल्यां वार्ताहरान् सविस्तरं विज्ञापयन् केन्द्रीय पर्यावरण वन जलपरिवर्तन विभागीय मन्त्री प्रकाश जावडेकरः राज्य प्रशासनानि आग्रहीत् यत् तैः भविष्यनिवेशाय वनरोपण कार्यक्रमार्थं स्वीयः वार्षिक व्ययभागः विवर्धनीयः

आकाशवाण्याः वार्ता चर्चा कार्यक्रमे भागमावहन् अतिरिक्तो मुख्य सचिवः कुमार सञ्जय कष्णः असुचयत् यद राज्ये शान्तिपूर्णा स्थितिं स्निश्चेत्ं पर्याप्ताः स्रक्षा प्रबन्धाः प्रशासनेन परिकल्पिताः सन्ति श्रीकृष्णः स्पष्टमकरोद यत् राष्ट्रिय नागरिक पञ्जिकायां येषां नामानि नोल्लिखितानि ते वैदेशिक जन प्राधिकरणे स्वीयानुरोधं प्रस्तोत् सुतराम् अवसरं प्राप्स्यन्ति क्रिकेट भारत वेस्टइण्डीजयोर्मध्ये द्वितीया अन्तिमा च अन्ताराष्ट्रिय क्रिकेट् निकष स्पर्धा अद्य जमैकायां किंग्स्टन् नगर स्थे सबीना पार्क क्रीडा प्रांगणे समायोज्यते